कृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण अपि निगदितं यत् एकोनत्रिंशत् कोटिपरिमितादप्यधिका कृषका अनया बीमायोजनया लाभान्विता सार्धपंचकोटिमिताश्च नवीना कृषका पंजीक्रियमाणा सन्ति

कर्णाटक मन्त्रिमण्डले अदय सप्त नवीनमन्त्रिण समायोजिता आराष्ट्रे विभिन्नानि कृषिपर्वाणि परिपाल्यन्ते देशस्य च प्रम्खनेतृभि देशवासिभ्य वर्धापनानि श्भाशयाश्च प्रदत्ता

तेनोक्तम् यत् योजनेयं कृषकान् संबलयति तेषाम् आर्थिकार्जनमपि स्निश्चयति

तेभ्य एकचत्वारिंशत् सप्तशतोत्तर अष्टसहस्रकोटि रूप्यकाणि प्रदत्तानि इत्यपि गृहमन्त्रिणा प्रतिपादितम्

विगतास् चत्र्विशति होरास् सप्तदशोत्तर अष्टशताधिक सप्तदश सहस्रं जना स्वस्थीभ्य गृहं प्रत्यागता एवम् आहत्य स्वस्थीभ्रतानां सङ्ख्या नवविंशतिसहस्रोत्तर एकलक्षाधिक कोट्येकमितं संवृत्ता देशे प्रवर्तमान प्रकरणानि सप्ताधिकपञ्चशत उत्तर चत्र्दशसहस्राधिक द्विलक्षमितानि सन्ति विगतास् चत्र्विशतिहोरास् दव्याधिकदविशतं जना महामार्या अस्या प्रभावेण कालकवलिता

मुख्यमन्त्री बी एस येदियुरप्पा उद्घोषितवान् यत् उमेशकट्टी अरविन्द लिम्बवली म्रूगेश निरानी एसअंगारा इमे च विधायका एम् टीबी नागराज आरशंकर सीपीयोगेश्वर च पार्षदा इमे नूतन मन्त्रिपदानां शपथग्रहणं विधास्यन्ति अयं मन्त्रिमण्डलस्य तृतीयो विस्तार भविता निश्शंक नवीन शिक्षा नीति केन्द्रियशिक्षामन्त्रिणा रमेशपोखरियालनिश्शंकेन वरिष्ठाधिकारिभि सह न्तन शिक्षा नीते कार्यान्वयनस्य समीक्षा विहिता उपवेशनेऽस्मिन् तेन उच्चशिक्षा विद्यालयीय शिक्षयोर्मध्ये न्तनशिक्षानीते कार्यान्वयनाय कार्यबलैकस्य संघटनाय परामृष्टम्

श्रीनिशंकेन न्तनाया शिक्षानीते सत्वरकार्यान्वयं सुनिश्चेत्म् उच्चशिक्षाविभागस्य सचिवस्य नेतृत्वे एकैकस्या समीक्षासमिते कार्यान्वयनसमितेश्च घटनाय परामर्शो दत्त श्रीपोखरियालेनोक्तम् यत् राष्ट्रियशिक्षाप्रौद्योगिकी मञ्च अपि च राष्ट्रियान्संधान आधार अस्या शिक्षानीते साफल्याय महत्वपूर्णौ स्तः तेन आगामि सत्रे अनयो स्थापनाय अधिकारिण निर्दिष्टा

प्रसारभारत्या एतदपि स्पष्टीकृतं यत् कस्यापि आकाशवाणीकेन्द्रस्य निम्नस्तरीकरणम् उतो वा परिवर्तनात्मकं किमपि कार्य न विधीयते आकाशवाणीकेन्द्राणि स्थानीयाना जनानां प्रतिभाभिवर्धनम् अपि च तत्रत्यानां भाषिक सामाजिक सांस्कृतिक जनसांख्यिकीयानां कार्यक्रमाणां प्रसारणं यथावत् स्थास्यते

सूच्यौषधीकरणम भारतं विश्वस्य सर्वथा बृहत्तमस्य सूच्यौषधीकरणचक्रस्य प्रारम्भं शनिवासरात् विधास्यति चिरप्रतीक्षितं सिरमसंस्थानेन विनिर्मितं सूच्यौषधं कोविशील्ड् इत्यस्य वितरणम् अपि प्रारब्धम् अस्ति जीबीपन्त चिकित्सालयस्य वैद्यः डॉसंजयः पाण्डे अवोचत् यत् सर्वकारेण इदं सुनिर्णीतमस्ति यत् प्राथम्येन सृच्यौषधं स्वास्थ्यकर्मिणां अग्रिमपंक्ते कर्मिणां च कृते प्रदास्यते जनान् समाश्वासयन् डॉ पाण्डे अवोचत् यत् सूच्यौषधं पूर्णतया स्रक्षितमस्ति अपि च जना सुच्यौषधीकरणे पूर्ण सहयोगं विदधत् प्रधानमंत्री समझौता केन्द्रियमन्द्रिमण्डलेन संयुक्तअरबअमीरात देशेन सह ऋतुसंबन्धित प्राविधिक प्रकरणमालक्ष्य क्रियमाणाय संधिप्रकरणाय स्वीकृति दत्ता अनेन ज्ञापनेन देशयोर्मध्ये ऋत्विज्ञान भूकंपीयपरिघटना महासागरीय गतिविध्यादि सम्बन्धितसूचनानाम् आदानप्रदानयो सहायता मेलिष्यति ज्ञापनमिदं वैज्ञानिक प्राविधिक सूचनानां दानादानयो विशिष्टक्षमताया विकासे पारस्परिक सहयोगेन सह सागरीय झंझावातादीनां च पूर्वान्मानाय सौविध्यकरं भविष्यति इति

अभिनवशिक्षानीतौ यूनां विचाराणां चिन्तनशक्तेश्च वर्धनाय प्राथमिकता सन्ति उपकल्पिता अवधेयास्पदं तथ्यमिदं यत् प्रधानमन्त्री नरेन्द्रमोदी हय हृश्य श्रव्य परान्तर्जालीय माध्यमेन राष्ट्रियय्वसंसद समापनसत्रं सम्बोधयन् अवादीत् यत् राष्ट्रनिर्माणदिशि अभिनवशिक्षानीतिपरो निर्णयो वर्तते महत्वपूर्ण

लोहडी शभकामना अद्य देशस्य राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च देशवासिभ्य देशस्य विभिन्नेष् भागेष् परिपाल्यमानानाम् पर्वणां श्भेच्छा वितरिताः अदय आराष्ट्रे लोहड़ी मकरसंक्रान्ति पोंगल भोगाली बिह उत्तरायणी पौषपर्वादीनि सोत्साहं च परिपाल्यन्ते आकाशवाणीपक्षत सर्वेभ्य श्रोतृभ्य अपि अस्य पर्वण श्भेच्छा वर्धापनानि च इति वार्ता